एतदर्थं निवेद्यते यत् असवाधनतां मा व्यवहरन्त् सममेव पञ्चचत्वारिंशत् वर्षतो वयोधिकैः सर्वैः जनैः सूच्यौषधं स्वीकरणीयम्

उभयोः देशयोः कोविडस्थितिम् अभिलक्ष्य विस्तरेण चर्चा जाता चर्चावधौ कोविडमहामार्याः नियन्त्रणाय प्रचाल्यमानानां सूच्यौषधीकरणप्रयासानां आवश्यकौषधानाम् आपूर्तेः तथा च चिकित्सा उपकरणानाम् उपलब्धतां सुनिश्चेतुम् उपायानां च उपरि चर्चा जाता श्रीमान् मोदी अमेरीकाद्वारा भारताय प्रदीयमानाय साहाय्याय राष्ट्रपतेः जो बाइडेनस्य धन्यवादम् अकरोत्

अमेरिकायाः राष्ट्रपतिना सह वार्तालापे सूच्यौषधनिर्माणाय आवश्यकसामग्रीणाम् आपूर्तेः महत्त्वम् अभिलक्ष्य अपि बलं प्रदत्तम् प्रधानमन्त्रिणा इदम् अपि उक्तं यत् स्वास्थ्यक्षेत्रे भारत अमेरिकयोः सहभागिता कोविडप्रभूतेः वैश्विकाह्वानस्य समाधानं कर्त् शक्नोति बाइडेनेन सह वार्तालापाद् अनन्तरं एकस्मिन् ट्वीटलेखे श्रीमान् मोदी असूचयत् यत् बाइडेनेन सह वार्तालापे सूच्यौषधनिर्माणाय आवश्यकसामग्र्याः आपूर्तेः उपरि विशेषबलं प्रदत्तम स्च्यौषधम् अधिदेशं अद्यावधि पञ्चाशल्लक्षाधिक चत्र्दश कोटितोप्यधिका लाभार्थिन सूच्यौषधं स्वीकृतवन्त आहत्य त्रिनवतिलक्षस्वास्थ्यकर्मिणः प्रथमं सूच्यौषधं तथा च षष्टिलक्षाधिकस्वास्थ्यकर्मिभिः द्वितीयं सूच्यौषधलाभः सम्प्राप्तः अस्ति स्वास्थ्यमंत्रालयस्य संय्क्तसचिवः लव अग्रवालः नवदिल्ल्यां वार्ताहरान् ज्ञापितवान् यत् नवदशलक्षाधिकैककोटितोधिकैः अग्रिमपङ्क्त्याः कार्यकर्तृभिः प्रथमं तथा च त्रिषष्टिलक्षाधिकैः स्वास्थ्यकर्मिभिः द्वितीयं सूच्यौषधं स्वीकृतम् अस्ति तेनोक्तं यत् पञ्चचत्वारिंशत्तः व्योधिकैः अशीतिलक्षाधिकनवकोटितोधिकैः जनैः प्रथमं सूच्यौषधं स्वीकृतम् अस्ति स्वास्थ्यसचिवः निर्दिष्टवान् यत् सर्वे सामाजिकद्रतां परिपालयन्तु एकः सङ्क्रमितजनः एकस्मिन् एव समये षड् जनान् सङ्क्रमितान् कर्त् शक्नोति केन्द्रीय स्वास्थ्य मंत्रालय अवोचत् यत् विगते अहोरात्रे नवपञ्चाशत् सहस्राधिक त्रयस्त्रिंशल्लक्ष संख्याका लाभार्थिन सूच्यौषधं प्राप्तवन्त मईमासस्य प्रथमदिनात् सर्वेभ्यः अष्टादशवर्षतोधिकेभ्यः स्च्यौषधलाभः सम्पलब्धः भविष्यति

आहत्य साम्प्रतं यावत् संक्रमितानां संख्या त्रिसप्तति लक्षोत्तर एककोटिमिता संवृत्ता चिन्ताकुलं अस्ति यत् अहोरात्रावधौ द्वादशाधिक अष्टशतोत्तर द्विसहस्र मिता विषाण् पीडिता कालकवलिता अभ्वन् इत्थं अध्ना पर्यन्तं मृतकानां संख्या समेध्य भ्योपि पंचनवति सहस्राधिकैकलक्षमिता संजातास्ति विगते रात्रिंदिवे नवदश सहस्राधिक द्विलक्षं जना स्वस्थ्यलाभं प्राप्य चिकित्सालयेभ्यो विमुक्ता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 आयषमंत्रालयः आयुष मंत्रालयेन कोरोना महामार्या प्रवर्तमानं द्वितीयं प्रकोपं ध्यात्वा आयुर्वेद यूनानी चिकित्सकेभ्य संशोधित दिशा निर्देश प्रकाशित अस्ति अयं दिशानिर्देश संक्रमणस्य निवारक उपायै सममेव गृहे सम्पर्क शून्य अवस्थायां निवसतां विषाणु पीडितानाम् उपचाराय अपि लाभप्रद अस्ति उक्ता दिंनिर्देशा परामर्शाश्च आयुष मंत्रालय द्वारा गहनविचारविमर्शानन्तरं प्रख्यापिता सन्ति आय्ष अन्संधान विकास कार्यदलेन अपि च अधिकार प्राप्त समित्या अस्मिन् सन्दर्भे अनुसन्धानं कृतम् अस्ति गते वर्षे अपि आय्ष मंत्रालयेनकोरोनासंक्रमणस्य उपचाराय स्वास्थ्य संबद्ध एक परामर्श प्रकाशित आसीत् अस्मिन् सन्दर्भे मंत्रालयेन आय्षक्वाथ समानस्य आयुर्वेदसम्बद्धस्य औषधे उपयोग वर्धित अस्ति औषधम् इमम् चतुर्णाम् आयुर्वेदिक औषधानां एक सरल सम्मिश्रणम् अस्ति

केन्द्रसर्वकारेण दशमीट्रिकटनमितात्मकक्षमतायाः तथा च विंशतिमीट्रिकटनमितात्मकक्षमतायाः विंशतिः क्रायोजेनिकभण्डारकाणि आयातितानि देशे आक्सीजनभण्डारकाणां न्यूनतां दूरीकर्तुं एतानि विभिन्नराज्येभ्यः आबण्टितानि आक्सीजनपरिवहनवर्धनाय एतानि क्रायोजेनिक आईएसओभण्डारकाणि आयातितानि परिवहन राजमार्गमंत्रालयः उद्योग आंतरिक व्यापार संवर्धन विभागेन सह परामर्श कृत्वा एतानि मध्य प्रदेश उत्तर प्रदेश राजस्थान दिल्ली ग्जरातानाम् आपूर्तिकर्तृभ्यः आबण्टितानि ब्रिटेनदेशात् चिकित्सासाहाय्यस्य प्रथमक्षेपः अद्य भारतम् प्राप्तः विदेशमन्त्रालयेन उक्तम् अस्मिन् क्षेपे वेण्टिलेटर् आक्सीजनसंरक्षकाणि च सम्मिलितानि सन्ति अमरीका फ्रांस जर्मनी इजराइलप्रभृतीभिः देशैः महामार्याः प्रतिसङ्घर्षे भारतस्य सहयोगाय विश्वासः प्रदत्तः अस्ति कर्नाटकम् कर्नाटके कोरोना संक्रमणस्य श्रृंखलाया विच्छेदनाय राज्य प्रशासनेन अद्य प्रभृति चतुर्दश दिवसात्मक जनसंचरणावरोध प्रवर्तित निर्देश अद्य रात्रौ नववादनात् आरभ्य आगामि मासस्य द्वादश दिनांकं यावत् परिपालयिष्यते

बेंगल्रूनगरे समायोजिते मंत्रिमंडलस्य मन्त्रणानन्तरं घोषणेयं विहिता मुख्यमंत्री बी एस येडिय्रप्पा अवदत् यत् राज्ये परिवहन सेवापि सप्ताहद्वयं यावत् पिनद्धा भविष्यति सममेव सकलेष् सामाजिक गतिविधिष् प्रतिबन्ध प्रकल्पयिष्यते अत्रांतरे विवाह समारोहेष् केवलं पंचाशत् जना अंत्येष्टि क्रियायां च केवलं पंचजना सम्मिलिता भविष्यन्ति तत्रापि कोरोनाया दिशा निर्देशा अवश्यं अन्पालयिष्यन्ते

हजभवनानि केन्द्र प्रशासनेन निर्दिष्ट यत् देशस्य विभिन्नेष् राज्येष् प्रतिष्ठापितानि हज भवनानि अस्थायित्वेन कोरोना रोगिणाम् उपचाराय प्रयोक्ष्यन्ते निर्णयानन्तरं केन्द्रीय अल्पसंख्यक प्रकरणानां मंत्री मुख्तार अब्बास नकवी नैकेष् राज्येष् हज भवनानां स्थितिं समीक्षितवान्